भारत पाकिस्तानयो सीम्न संरक्षणार्थं ड्रोनाक्रमणं च सम्म्खीकर्त्ं सीम संरक्षा बलं नूतन प्रौद्योगिकीनां प्रयोगं विधत्ते तेलंगानाराज्ये महिला चिकित्सकेन सार्धं दृष्कर्म हत्याप्रकरणे त्रय आरक्षिकार्मिका निलम्बिता भारतीय पुरूषदलं त्रयोदशे दक्षिणैशिया क्रीडानां वॉलीबॉल प्रतियोगिताया निर्णायक द्वन्द्वे समाविष्टम् महाराष्ट्र महाराष्ट्र विधानसभाया अध्यक्षपदार्थं चित कांग्रेस्दल विधायक नाना परिलि घोषणेयं महाराष्ट्र विधानसभाया सामयिकाध्यक्षेण दिलीप वाल्से पार्टिज़िन विहिता घोषणाया प्राक् भाजपा प्रत्याशिना किशन कथोरे इत्यमुना विधानसभाया अध्यक्षपदाय प्रपूरितं स्वीय नामांकनं परावर्तितम् आसीत् विधानसभाध्यक्षत्वेन नाना पर्तिते इत्यस्य चयनप्रसंगे मुख्यमन्त्री उद्धव ठाकरे न्यगादीत् यत् परिलेवर्य कृषक परिवारात् समागच्छति असौ सदने सवैं सार्धं न्यायपर व्यवहारं समाचरिष्यति नाना परिले विदर्भे सकोली विधानसभा क्षेत्रस्य प्रतिनिधित्वं करोति

नवनिर्वाचितेन अध्यक्षेण नाना परिले इत्यमुना अद्य सदने घोषणेयं विहिता मुख्यमन्त्रिणं उद्धवठाकरेवर्यं समेत्य अन्ये मन्त्रिभिश्व नव निर्वाचित विपक्षिदल नेता श्रीफडणवीस वर्धापित

वस्तु सेवाकर जीएसी इति वस्तु सेवाकर प्रणाल्या प्रवर्तनेन तत्प्राप्त धनेन च राजस्वे वृद्धि समधिगता गतवर्षापेक्षया नवम्बरमासे राजस्व संप्रहणे प्रतिशतं षण्मितं संवर्धितम्

गृहराज्यमन्त्री अद्य नवदिल्यां सीम सुरक्षा बलस्य पञ्चपञ्चाशत्तमे स्थापना दिवसोत्सवे सम्बोधयति स्म अमनोक्तं यत् अन्तार्राष्ट्रिय सीमस् भारतीय सुरक्षा बलानां सतर्कतावधानेनैव देशवासिन सुरक्षिता अनभवन्ति अत्रावसरे सीमासुरक्षाबलस्य महानिदेशकेन वी के जौहरी इत्यमुना प्रतिपादितं यत् भारत पाकिस्तानयो सीम्न संरक्षणार्थं ड्रोनाक्रमणं च सम्मुखीकर्त् सीम सुरक्षा बलं नूतन प्रौद्योगिकीनां प्रयोगं विधत्ते